दशकेन्द्रियमन्त्रिण कुर्वन्ति विशेषजनसम्पर्काभियानं जम्मूकश्मीरे विभिन्नजनपदेषु प्रखण्डेषु च स्वास्थ्यमन्त्रालय उदीरितवान् शत् प्रशासनं सन्नद्वं चीनदेशे प्रसरितस्य कोरोन वायरस् इति विषाणुना मुक्त्यथं राष्ट्रं समर्पयति श्रद्धाञ्जल नेताजीसुभाषचन्द्रबोसस्य जन्मजयत्युपलक्ष्ये असमप्रदश्ची उग्रवादिनां सम्पणम् असमप्रदेशे विभिन्नाष्टगुल्मानां चतृश्चत्वारिशदृत्तरषट्शता अप्रवादिभि अद्य गौहाट्यां मुख्यमन्त्री सर्बानन्द सोनोवालस्य राज्यस्य वरिष्ठाधिकारिणां च समक्षे आत्मसमर्पणं कृतम् प्रत्यर्पणकर्तृष् उग्रवादिष् उलफास्वतन्त्रस्य पञ्चाशत् नेशनल डेमोक्रेटिक फ्रन्ट ऑफ बोडोलैंड इति दलस्य अष्ट आदिवासी ड्रेगन फाइटर इति गुल्मस्य अष्टसप्तत्य्रक्रितं आतंकवादिन समावेशिता आसन् उप्रवादिनां मुख्यधारायां स्वागतं कुर्वन् मुख्यमन्त्रिणा ते अध्यर्थिता यत् ते सर्वेऽपि राष्ट्र निर्माणप्रक्रियायां योगदानं दद्यू जम्मूकश्मीरलोकसम्पर्क केन्द्रशासितप्रदेशविनिर्माणानन्तरं जम्मूकश्मीर केन्द्रप्रशासनस्य विशेष लोकसम्पर्काभियानान्तर्गतमद्य षष्ठे दिवसे दश केन्द्रियमन्त्रिण विभिन्नजनपदानां विकासप्रखण्डानां निरीक्षणं कृर्वन्त सन्ति केन्द्रीयमन्त्रिण जीकिशनरेड़डी रविशंकरप्रसाद श्रीपदनाइकश्च बारामूला श्रीनगरक्षेत्रेष् जनसम्पर्काभियानं कुर्वन्ति अपरे च मन्त्रिण पुरूषोत्तमरूपाला रेणकासिंह अगाड़ीसुरेश सोमप्रकाश साध्वी निरञ्जनज्योति फग्गनसिंहक्लस्ते रामेश्वरतेली जम्मूक्षेत्रस्य निरीक्षणं विदधति

राष्ट्रियराजधानीक्षेत्रे मुख्यसमारोह राजपथे भविष्यति यत्र राष्ट्रपती रामनाथकोविन्द पथसञ्चलसदस्यानां अभिनन्दनं स्वीकरिष्यति ऐषम वर्षे ब्राजीलदेशस्य राष्ट्रपति जेयर मेसियास बोलसोनावर्य क्रिसप्ततितमस्य गणतन्त्रदिवसस्य मुख्यातिथि भविष्यति अद्य प्रात राजपथे गणतन्त्रदिवसीय पथसञ्चलनस्य पूर्ण प्र्वसज्जा प्रस्तुता

मुख्यमन्त्रिणा अशोकगहलोतेन साहित्योत्सवस्य उद्घाटनं कुर्वता असौ उत्सव जयपुरगौरवत्वेन प्रख्यापित तेनोक्तं यत् अनेन साहित्योत्सवकारणेन जना राजस्थानस्य अपूर्वां संस्कृति जानन्ति उत्सवोऽयं विगतेभ्य त्रयोदशवर्षेभ्य प्रत्येकस्मिन् वर्षे आयोज्यमाण वर्तते कोरोना विषाण् केन्द्रप्रशासनं ब्रते यत् चीनदेशे व्याप्तेन कोरोनावायरस् इति विषाण्ना मुक्तये भारतदेश पूर्वतया सक्षम सज्जितश्व चीनदेशे अम्ना विषाणुना मृत्यकानां संख्या समेध्य सप्तदश जाता अस्ति विषाणुप्रभावितानां च जनानां संख्या सार्द्वपञ्चशतं यावत् प्राप्ता